विशाखा पत्तने अनुवर्तमानायां प्रथम क्रिकेट् निकष स्पर्धायाम् अद्य अन्तिमे दिवसे दक्षिणाफ्रीका स्वीय द्वितीय पाल्यां ह्यः समर्जितेभ्यः एकादश धावनांकेभ्यः अग्रे क्रीडिष्यति

ततः पूर्व ं गतदिवसे नवदिल्ल्यामायोजिते द्वि पाक्षिके मन्त्रणोप वेशने प्रधानमन्त्री श्रीनरेन्द्र मोदी बांग्लादेशीया तत्समकक्षा शेख हसीना च विभिन्नान् पारस्परिक हित विषयान् अधिकृत्य चर्चाम् अनुष्ठितवन्तौ नेतु द्रयेन अवसरेऽस्मिन् पारस्परिक सम्बन्धानां क्षेत्रीय विषयाणां च सर्वेऽपि पक्षाः सविस्तरं समीक्षिताः प्रधानमन्त्रिणा श्रीनरेन्द्र मोदिना आतंकवादं विरुध्य बांग्लादेशीया पूर्णतः अमर्षण परा नीतिः नितरां प्रशंसिता मिज़ोरम अमितशाह ग्हमन्त्री अमितशाहो न्यगादीत यद उत्तर पूर्वीय क्षेत्रस्य विकासे हस्तशिल्पो महतीं भूमिकां निर्वोद्महति तेनोदीरितं यदनेन क्षेत्रेऽस्मिन् पर्याप्ताः आजीविकाऽवसराः समुद भावयितुं शक्याः सः गतदिवसे मिज़ोरमस्य राजधान्याम् आज्ञॉल् नगर्यां हस्तशिल्प प्रदर्शन्याः उद्घाटनाऽनन्तरं जनसभामेकां सम्बोधयति स्म

आरक्षिभिः व्विनीं यावत् एकोनविंशतिः प्रदर्शनकारिणः निग्हीताः सन्ति